सम्प्रति अस्य मासस्य सप्तदशदिनांकम् यावत् पूर्णपिधानं निर्णितम्

कोविडसन्देश प्रिय श्रोतार समस्तेऽपि देशे पुनः समेधमानेन विकराल कोरोना संक्रमणेन जनसामान्याः भयाकुलाः दरीदृश्यन्ते अतः भवन्तः प्रार्थ्यन्ते यत् सूच्यौषधम् अवश्यमेव स्वीकुर्वन्तु असावधानतां नैव आचरन्तु

मुखावरकं सन्धारयन्तु दैहिक दौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

विगतकतिपयेषु दिनेषु श्रीमोदिना निरन्तरं कोरोनास्थितिविषये मुख्यमन्त्रिभिः समं संवादः क्रियते

उपवेशनेऽस्मिन् युरोपीयसंघस्य सप्तविंशतिराष्ट्राणाम् नेतार अपि च यूरोपीयपरिषद अयोगस्य च अध्यक्ष उपस्थिता आसन् यूरोपीयसंघेन प्रथमबारं पृथक् प्रणाल्यां भारतदेशेन सह उपवेशनस्य नेतृत्व विहीतम् अस्य समायोजनं पुर्तगालदेशस्य प्रधानमंत्रिणा एन्टोनियो कोष्टा महोदयस्य मार्गनिर्देशने प्रवृतम् अत्रावसरे भारतवित्तमन्त्रलययूरोपीयनिवेशवित्तकोषाभ्याम् पुणे मेट्रोरेलपरियोजनायै पञ्चदशकोटियुरोपीयन मुद्रायाः अनुबन्धे हस्ताक्षरः विहितः

एतेषु प्रायश चत्वारिंशदधिक पञ्चनवतिलक्षमितेभ्य चिकित्सा कर्मिभ्य प्रथमबारं चतुःषष्टिलक्षमितेभ्यः च द्वितीयबारम् इदं प्रदत्तम् देशन कोरोनामहामार्याः बृहत्तमं सूच्यौषधवितरणाभियानं वर्षस्यास्य जनवरीमासस्य षोडशदिनांकात् समारब्धम् असीत् सम्प्रति सूच्यौषधवितरणाभियानस्य तृतीयचरणं प्रचलति एतत् हि अस्य मासस्य आदिमदिनांकात् प्रारब्धम् अस्मिन् सूच्यौषधवितरणाभियानस्य तृतीयचरणेअष्टादश वर्ष तोऽधिक वयो मितेभ्यः सर्वेभ्यः जनेभ्यः कोविड सूच्यौषधस्य वितरणं प्रदीयमानं वर्तते स्वास्थ्यमंत्रालयेन सूचितं यत् विगते अहोरात्रे एव त्रयोविंशति उत्तर विंशतिलक्षमितेभ्यः इदं प्रदत्तम्

प्रदेशस्य निकटतमस्वास्थ्यकेन्द्रेषु सेवेयं उपलब्धो भविष्यति एतदर्थं पञ्जीकरणम् तथा स्थाननिश्चयनम् अनिवार्यमस्ति

अस्यां अवधौ मेट्रोसेवा अपि बाधिता भविष्यति

सूच्यौषधविषयेपि सः उक्तवान् यत् केन्द्रः शीघ्रमेव सूच्यौषधं दिल्लीम् प्रदास्यति तत्रैवउत्तरप्रदेशे अपि पूर्णपिधानं सप्तदशदिनांकपर्यंत प्रचलिष्यति

असौ ही जल्कबाड़ी विधानसभानिर्वाचनक्षेत्रात् निर्वाचितः अपि च दीर्घकालात् भारतीयजनतापार्टीति दलस्य सदस्यः च वर्तते गुवाहाटीनगरे अद्य नवनिर्वाचितविधायकानाम् उपवेशने अयं विधायकदलस्य नेता चयनितः उपवेशनेऽस्मिन् केंद्रीयप्रेक्षक नरेंद्रसिंहतोमर अरुण सिंह विजयन्ता जयपण्डा इत्यादयः नेतारः समुपस्थिताः आसन्

मन्त्रालयेन निगदितं यत् एतयो औषध्योः क्षमता बहु स्तरीय नैदानिक परीक्षणेन माध्यमेन सिद्धा अस्ति अवसरेस्मिन् केंद्रीय मंत्रिणा किरण रिजिज्ञ वर्येण कथितं यत् इयम् अभियानम् एतदर्थं अस्ति यत् इच्छुका जना कुशलतया औषधिम् प्राप्तुम् शक्रुवंति आकाशवाण्या एकस्मिन् कार्यक्रमे आय्ष अनुसंधान विकास कार्यबलस्य अध्यक्षेण प्रोफेसर भूषण पटवर्धनेन प्रोक्त यत् इमे औषधी शीघ्रोपचार पद्धतौ शीघ्रलाभः प्रदास्यतः डीआरडीओ रक्षा अनुसंधान एवं विकास संघठनेन कोरोनायाः उपचारे एकाम् औषधिम् विकासयित्वा महत्वपूर्णा सफलता अधिगता संघठनम् अस्याः उपयोगस्य अनुमति अपि भारतीय औषधि महानियंत्रकेन प्रदत्ता कोरोनाया द्वितीय प्रकोपे इयम् औषधि टू डिटॉक्सी डी ग्लूकोज़ कोविड रोगिणाम् उपचारे उपयोगी अस्ति अस्या प्रयोग जलेन साकं भविष्यति अद्यावधि परिक्षणेन इयं औषधि शीघ्रतया रोगिणाम् उपरि कार्यम् करोति अस्या उत्पादनमपि सरलमस्ति